देश विशेषस्य नामोल्लेखं विनैव श्रीमोदिना संकेतितं यत कृत्स्नं जगज्जानीते यत को नाम देश आतंकवादं प्ष्पाति प्रोत्साहयति चेति

श्रीमोदिना समुदीरितं यत कश्मीरात सप्तत्यधिक त्रिशत तम्या संविधान धाराया प्रति संहरणेन केचिज्जना नितरां संकटापन्ना दृश्यन्ते ते स्व देशम आतंकि पाशाद् विमोचयित्ं न शक्न्वन्ति हाउडी मोदीति कार्यक्रमे राष्ट्रपतेष्ट्रम्पस्य नैकेषां सांसदानां चोपस्थितिं तैः भारतस्य प्रगतिमधिकृत्य विहितां चर्चा चाभिनन्दता प्रधानमन्त्रिणा प्रोक्तं यदेषा तावत सार्धैकार्ब्द संख्यकानां समेषामिप भारतीयानां महती सम्पलब्धि विद्यते श्रीमोदी न्यगादीत यदेष कार्यक्रमस्तावद् भारताड़मेरिकयो सौहार्द सम्बन्धानां न्तनमैतिह्यं प्रस्तौति श्रीमोदिन उद्गार प्रकाशनाज्नन्तरं स्वीयं हार्द सम्दगिरन ट्रम्प अवदत यद विश्वस्माद् विश्वाद् अतिवादि इस्लामिकातंक वादम उन्मूलयित्म उभावपि भारतामेरिका देशौ सम्भ्य कार्यमन्तिष्ठत तेनोदीरितं यद् उभाभ्यामपि देशाभ्यां सीमा स्रक्षा सर्वोच्च प्राथम्यं विद्यते तेन मोदिना भारते प्रवर्त्यमानानि परिष्काराभियानानि भूशं प्रशंसितानि

एतदर्थ सर्वविधा सज्जा प्रकल्पिता सन्ति